प्रधानमन्त्री जनसभा प्रधानमन्त्री नरेन्द्रमोदी जनान् अध्यार्थयत् यत् ते हिंसाम् सामाजिकसम्पत्तेः हानिं च परित्यजन्त् प्रोक्तं च यत नागरिकता संशोधनाधिनियमस्य सम्बन्ध जाति धर्म सम्दायविशिष्टेन साकं नैवास्ति स्पष्टीकृतं यत् राष्ट्रियनागरिकता पंजिका विषयको निर्णय असमसम्बद्वो नैव वर्तते राजधान्यां नवदिल्ल्यां रामलीला प्राङ्गणे अद्य भाजपादलेन देहल्या सपादसप्तदशशताधिक अनधिकृतावासीय प्रखण्डानां नियमितिकरणाय धन्यवादसभा आयोजिता नागप्रे जनसभा केन्द्रीयमन्त्री नितिनगडकरी अद्य नागप्रे नागरिकता संशोधन विधिम् अधिकृत्य प्रावोचत् यत् अधिनियमोज्यम् मुस्लिमानाम् अल्पसंख्यकानां च विरुद्वं नास्ति श्रीगडकरी प्रत्यपादयत् यत् विपक्षिण राजनीतिकलाभाय अल्पसंख्यकेष् भयमुत्पादयितूं दुष्प्रचार ं क्वन्ति अमुनोक्त यत् सर्वधर्मसमानता भारतीयसंस्कृते प्राधान्यं विद्यते झारखंड झारखंड विधानसभा निर्वाचनस्य मतगणनायै पूर्णसज्जा विहिता मुख्य निर्वाचनाधिकारी विनयक्मारचौबे न्यगादीत् यत् मतगणनाया प्रारम्भ प्रात अष्टवादनत भविष्यति एकाशीति सदस्यात्मिकाया विधानसभाया कृते नवम्बरमासस्य त्रिंशत् दिनांकत दिसम्बर मासस्य विंशति दिनांकं यावत् पञ्चचरणेष् मतदानानि अभवन् मेघालय मेघालयस्य राजधान्यां शिलांगनगर्या नागरिकता संशोधन विधिं विरुध्य हिंस्रघटनानां स्थगनानन्तरम् अद्य प्रात निषेधाज्ञा अपाकृता अद्य शिलांगे क्रिसमस महोत्सवाय विपणिष् जना गतवन्त राजधान्यां मार्गाणां स्सज्जा प्ष्पै कृतास्ति जम्मू जम्मूकश्मीरे चत्वारिंशत् दिवसीय भीषण शीतकाल चिल्लई कलान गतदिनतात् आरब्ध ऋत् विज्ञान विभागान्सारेण कश्मीरघाट्यां लद्दाखे च श्ष्कशीतस्य अन्मानं वर्तते अस्माकं वार्ताहरान्सारेण घाट्यां विगत दशदिवसेभ्य भीषण शीतलहरी वर्तते

उपराष्ट्रपति एमवेंकैयानायड् एकस्मिन् समारोहे प्रस्कारान् प्रदास्यति ग्जराती भाषाया हिलेरो चलचित्राय सर्वश्रेष्ठचलचित्रपुरस्कार प्रदास्यते आयुष्मानखुराना इत्यस्मै अन्धाधुन्ध चलचित्राय विक्कीकौशलाय उडी द सर्जिकल स्ट्राइक चलचित्राय सर्वश्रेष्ठ अभिनेत् सम्मान प्रदास्यते

भारतेन पणकं विजित्य कन्द्रकक्षेपणं स्वीकृतम् वैस्टइण्डीजदलेन निर्धारितेष् पञ्चाशत क्षेपचक्रेष् पञ्च क्रीडकाणां हानौ पञ्चदशोत्तरत्रिशतं धावनाङ्का निर्मिता